ब्रेवि चक्रवातकारणेन वातावरणविभागेन धीवरा शनिवासरं यावत् समुद्रं प्रति न गन्त् निर्दिष्टा ब्रिटेनदेशेन विश्वस्य प्रथम कोविड़ नवदशसुच्यौषधाय स्वीकृति प्रदत्ता कैनबरायां अनुवर्तमाना तृतीय एकदिवसीय अन्ताराष्ट्रिया क्रिकेट् स्पर्धा भारतेन विजिता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीक्वन्त् मुखावरंक सन्धारयन्त् सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु कृषिमंत्री कृषिमन्त्री नरेन्द्रसिंहतोमर कृषकान् समाश्वसयत् यत् नवीन कृषि परिष्कार अधिनियमा सन्ति कृषकोत्कर्षाय श्रीतोमर अवादीत् यत् यदि कृषकाणां कापि आपत्ति वर्तेत तर्हि सर्वकार तेषां चिन्ता दूरीकर्त् ं वार्तायै सज्जो वर्तते कृषिमन्त्री नरेन्द्र सिंह तोमर न्यगादीत यतु केन्द्रप्रशासनं कृषकाणां हितरक्षायै सर्वात्मना सर्वदा च विद्यते कृतसंकल्पम् एतेषां कल्याण विषयमवलम्ब्य संवादार्थम् प्रशासनस्य द्वाराणि सन्ति सदैव अनावृतानि चर्चावधौ अमूना विशेषज्ञ समिति संघटनस्य प्रस्ताव उपस्थपित येन सौहार्द सहमति पुरस्सर समस्याया अपाकरण भवेत्

श्रीशाह पञ्चपञ्चाशतमं आरक्षि महानिदेशक सम्मेलनं समुद्घाटयन् उक्त वक्तव्यं प्रकाशयत्

बुरेवि चक्रवात ब्रेवि चक्रवातकारणेन वातावरणविभागेन धीवरा शनिवासरं यावत समृद्रं प्रति न गन्तुं कथिता अद्य अपराह्णं यावत चक्रवातोऽयं रामेश्वरं निकषा यम्बनस्य पार्श्वे केन्द्रितो भविष्यति अनन्तरमु अयं दक्षिणतमिलनाड़ तटान् अतिक्रमिष्यति

मुख्यमंत्रिणा पिनाराई विजयन स्विाख्येन जना सावधानतया स्थात् निर्देशा प्रदत्ता सन्ति राष्ट्रिय आपत्मोचन बलं साहायोद्वार कार्याय सज्जीभूतम् वर्तते

सूच्यौषधमिदम् अग्रिम सप्ताहानन्तरं प्रयोगाय उपलब्धं भविष्यति

अत्र कोरोणाकाले आपणस्य व्यवधानरहितं प्रचालनाय कतिपया दिशा निर्देशा प्रसारिता सन्ति निर्देशानुसारि महामारि दष्प्रभावितेष् क्षेत्रेष् आपणानि नैव उद्घाटयिष्यन्ते

देशे गतमासत्रये करसंप्रहणे समागत अनारतं वृद्धि संकेतयति यत् देशे कोरोना नियन्त्रणाय प्रवर्तितं देशपिधानानन्तरं राष्ट्रं सामान्यस्थितिम् अधिगच्छति क्रिकेट कैनबरायां क्रीडिता तृतीय एकदिवसीय अन्ताराष्ट्रिया क्रिकेट् स्पर्धा भारतेन विजिता ऑस्ट्रेलियादलं च त्रयोदश धावनांकै पराभूतम् भारतेन पंच क्रीडकानां हानिपुरस्सरं द्वि अधिक त्रिशतं धावनांका समर्जिता